धनराशिरयं प्रधानमंत्री ग्रामीण आवास योजनाया अंतर्गतं प्रख्यापयिष्यते यद्धि प्रधानमन्त्रिणा मोदिना वीडियो कॉन्फ्रेंसिंग इति दृश्य श्रव्य मध्यमेन लाभान्वितेभ्य वित्तीय सहायता रूपेण प्रदास्यते प्रेषणानन्तरं प्रधानमंत्री संवादमपि करिष्यति अस्मिन् कार्यक्रमे ग्रामीण विकास मंत्री नरेन्द्र सिंह तोमरश्चापि सहभूतो भवष्यति ध्यानास्पदमस्ति यत् वर्तमान वित्त वर्षे गोरखपुर जनपदे प्रधानमन्त्रि ग्रामीण आवास योजनाया अंतर्गत द्वि नवत्य्तर सप्त सहस्राधिक एक लक्ष मितानां लाभार्थिनां चयनस्य लक्ष्यमधिगतमासीत् येष् पञ्चोत्तर अष्ट शताधिक षट सहस्राधिक एक लक्ष मितानां लाभार्थिनाम् आवेदनानि अन्मतानि आसन् तदन् लाभार्थिनां सत्यापनान्तरं कतिपयेभ्य लाभार्थिभ्य प्रथम पर्यायस्य धनराशि सुष्ठरीत्या सम्प्रेषित तेभ्य द्वितीयवारं धनराशि वितरिष्यते ध्यानास्पदमस्ति यदियं योजना षोडशोत्तर द्वि सहस्रतम वर्षस्य नवम्बरमासे प्रवर्तिता अवर्तत

अस्य सत्रस्य प्रथमावसानं फरवरीमासस्य पञ्चदश दिनांके भविष्यति यस्मिन् द्वादशोपवेशनानि भवितारः आय व्यय संकल्प पत्रक सत्रस्य प्रास्ताविकं द्वितीयोपवेशनं च मार्च मासस्य अष्टम्याम् समारप्स्यते यस्मिन् एकविंशतिः उपवेशनानि भविष्यन्ति ततः बिरलावर्येण प्रोक्तं यत् कोविड महामारीमालक्ष्य राज्यसभायाः उपवेशनम् प्रातः नववादनादारभ्य द्विवादनं यावत् भविता लोकसभायाश्च सायम् चत्र्वादनतः नववादनम् यावत् इति उपवेशनस्यास्य प्राथम्येन श्भारम्भः राष्ट्रपतेः कोविन्दवर्यस्य अभिभाषणपुरस्सर भवितेति सुविदितमेव

अनेन साकमेव स्वस्थता परिमिति समेध्य प्रतिशतं दशमलवोत्तर षट षडधिक षण्णवति मिता संजातास्ति विगत चत्र्विंशति होरास् कोविड संक्रमणस्य चतुष्षष्टयधिक दश सहस्रमिता रोगिण प्टिङ्गता सन्ति अस्मिन्नवसरे चत्श्शतोत्तर सप्तदश सहस्राधिका जना संक्रमण मुक्ता जाता सन्ति स्वस्थी भूयमानानां संख्या सक्रिय प्रकरणेभ्य पञ्चाशद्गुणिताधिका वर्त्तते देशे सम्प्रति सक्रिय प्रकरणानां संख्या प्रायः आहत्य द्वि लक्ष मितानां संक्रमितानां प्रकरणानां प्रतिशतं दशमलवोत्तर नवाधिक एक मितमवि वर्त्तते एतेष् प्रायः प्रतिशतं षष्टि मिता रोगिण एव आइसोलेशन इति पृथक्कृत्य स्थापिता सन्ति अथ च तेष् संक्रमणस्य अत्यल्प लक्षणानि सन्द्रश्यमानानि सन्ति स्वास्थ्य मंत्रालयो ब्र्ते यद् देशे चिकित्सा सुविधानां समेधनेन केन्द्रेण प्रख्यापित दिङ् निर्देशानां काठोर्येण परिपालनेन चिकित्सकानां चिकित्सा सम्बद्ध कर्मकराणां च निस्वार्थ सेवा कारणेन च देशे कोविड संक्रमणत स्वस्थीभ्यमानानां परिमिति परिष्कृता जायते स्वास्थ्य मंत्रालय एतदपि प्रत्यपादयत् यत् देशे संक्रमणत मृतकानां संख्या न्यूनीभूतास्ति

कृषक वार्ता केन्द्रीय सर्वकारेण सह कृषकप्रतिनिधीनां अद्यतन सुनिश्चितं दशमं सम्भाषणं श्वो भविता कृषिमन्त्रणा नरेन्द्र सिंह तोमरेण भणितं यत् सर्वकारः कृषकाणां समस्यायाः निराकरणाय सर्वदैव तत्परः अस्ति कृषि विधित्रयाणां प्रत्यंशं स्वीकृत्य संशय निरशनाय प्रशासनं सन्नद्धम् अस्ति इत्यपि निगदितम् मंत्रिणा

कृषि विधित्रयाणां प्रत्यावर्तनमतिरिच्य या कापि शंका क्रषकाणामस्ति तत्सर्वमपि द्रीकरिष्यते इत्यपि तेन प्रोक्तम्

संस्कृतिमन्त्रालयद्वारा प्रख्यापितायाम् सूचनायां प्रोक्तं यत् श्रीबोसवर्यस्य राष्ट्रं प्रति अतुल्योगदानस्य निःस्वार्थ सेवाभावनायाश्च स्मरणार्थं पराक्रम दिवसोऽयं घोषितः

जावडक्कि ई नाम पोर्टल सूचना प्रसारण मन्त्री प्रकाश जावड़ेकरः प्रत्यपादयत् यत् अशेषेऽपि देशे ई नाम पोर्टल इत्याख्येन वेबफलकेन साकम् आहत्य एक सहस्र मितानि मण्डीति अन्नाद विक्रय केन्द्राणि संयोजितानि सन्ति श्रीजावड़ेकरेण ट्वीट् सन्देश माध्यमेन सूचितम् यत् कृषकेभ्यः उत्पादानां सम्चित मूल्यलाभ प्रदानाय सर्वकारः प्रतिबद्धोऽस्ति अम्ना भणितं यत् एकं राष्ट्रम् एकम् आपणमिति लक्ष्यं सम्प्रयित् प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः मार्गदर्शनेन ई नाम पोर्टल इति फलकस्य स्थापना कृतास्ति

क्रमशः नैकेष् ट्वीटालेखेष् पृच्छन्न् आलोचयन् च भाजपादलाध्यक्षः न्यगादीत् यत् राहुलः मिथ्या अभाषीत् यत् न्यूनतम समर्थनमूल्यस्य समाप्तिः जायते सार्वकारिक कृष्योत्पादनकेन्द्राणि पिहितानि च जायन्ते कांग्रेसदलस्य नैर्वाचनिक घोषणापत्रेऽपि एतेषां विधीनां चर्चा आसीत्

क्रिक्ट्रि विजय आस्ट्रेलिया देशस्य ब्रिसवेन नगरे समायोजितायां क्रिकेट निकषस्पर्धायां भारतेन क्रीडक त्रयस्य सुरक्षापूर्वकं आस्ट्रेलियादेशः पराजितः बॉर्डर गावस्कर चषकम् पूर्ववत् भारतस्यैव पार्श्वे स्थास्यति गाबा क्रीडांगणे ऋषभपन्तेन एकोननवतिः श्भमन गिलेन एकनवतिः प्जाराचेतेश्वरेण च अर्ध शतकात्मक योगदानैः विजयोऽयं स्निश्चितः इतः पूर्व ं ह्यः क्रीडायाः चत्र्थे दिवसे चतुर्णवत्य्तर द्विशत धावनांकाः एव अष्ट्रेलियादेशेन विनिर्मिताः आसन् भारतेन च क्रीडकहानिं विनैव चत्वारो धावनांकाः योजिताः भारताय मोहम्मद सिराजेन पंचक्रीडकाः पातिताः शार्दूल ठाक्रेण चत्वारः वाशिंगटन सुन्दरेण चैकः गृहीतः ऐतिहासिकाय विजयाय वर्धापनानि देशवासिभ्यः इति प्रधानमन्त्रिणा स्वट्वीट्सन्देशे निगदितम्